झारखंडस्य तिम्र धन्धरा दीपिका क्मारी अंकिता भकत कोमोलिकाबारी च प्णेमध्ये आयोजितेष् राष्ट्रिय ओलम्पिक धन्र्परीक्षणेष् उच्चतमं स्थानं प्राप्तवत्य

अथ वार्ताः विस्तरेण मैत्री सेत् प्रधानमन्त्रिणा नरेन्द्रमोदिना भारत बांग्लादेशयोर्मध्ये मैत्री इत्यस्य सेतो दृश्य श्रव्य माध्यमेन उद्घाटनम् विहितम् त्रयस्रिंशदधिक किशतकोटि रूप्यकात्मक राशे निर्मितेन अनेन सेतूना भारतस्य सबरूम क्षेत्रस्य बांग्लादेशस्य रामगढ़ क्षेत्रेण सह सम्पर्क भविष्यति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् क्षेत्रे आधारशिला बांग्लादेशस्य प्रधानमन्त्रिणा शेख हसीनया स्वबांग्लादेशयात्रावसरे निहिता आसीत् सम्प्रति सेतुनिर्माणेन द्वयोरपि देशयोर्मध्ये मैत्री सम्बन्धान् दृष्किकरणे आर्थिक क्षेत्रे तीव्रविकासाय च महती सफलता भविष्यति स न्यगादीत् यत् अनेन पदन्यासेन भारते वंश अगरूवर्तिका अनानासफलानाम् उत्पादने वृद्धि भविष्यति अपि च अगरतला अन्ताराष्ट्रिय समुद्रीय समीपतम भारतीयनगररूपेण प्रसिद्धि लप्स्यते संसद्विराम ईधनमूल्यवृद्धिम् अभिलक्ष्य समृत्यन्नविरोधकारणात् उभयो सदनयो कार्यजातं निरन्तरं द्वितीये दिनेऽपि अद्य निरस्तम् लोकसभा राज्यसभा चेति उभे सदने भोजनकालाद प्राक् वारद्वयं विरमिते तदनन्तर द्विवादने अद्यतनं कार्यजातं निरस्तीकृतम् इत प्राक् कांप्रेस वामपन्थी डी मिके उसीपी शिवसेना प्रभृतीनां दलानां सदस्यै सर्वकारं विरूध्य घोषा उद्वोषिता लोकसभाध्यक्ष ओमबिरला वारंवारं विरोधं कुर्वत सदस्यान् स्वस्थानं ग्रहीत्ं प्रार्थयत् तेनोक्त यत् प्रश्नहोरा महत्वपूर्णो विद्यते सदनस्य कार्यजातं पूर्व द्वादशवादने निरस्तं तदनन्तरं द्विवादने सम्पूर्णदिवसाय इदं निरस्तीकृतम्

कांप्रेससदस्यै विरोधयोषप्रस्सरं विरोध स्थिति जनिता राज्यसभाया कार्यजातम् अपि पूर्वं द्वादशवादने विरमितं तदननतरं द्विवादने दिवसाय निरस्तीकृतम् राज्यसभा चिकित्सा विद्यालय स्वास्थ्य परिवार कल्याण मन्त्रिणा डॉ हर्षवर्धनेन अद्य राज्यसभायाम् प्रोक्त यत् केन्द्र प्रशासनेन प्रायोजित योजनान्तर्गतं चरणत्रये सप्तपंचाशदधिक क्रिशतं चिकित्सकीय महाविद्यालया स्वीकृता स प्रोक्तवान् यत् इमे चिकित्सा विद्यालया जनपद चिकित्सालयात् अनुमोदित चिकित्सालयात् च सम्बद्धा जम्मू कश्मीर पर्यटन गुह राज्मन्त्रिणा जीकिशन रेड्डी वर्येण प्रोक्त यत् सप्तत्यधिक त्रिशतम् अनुच्छेदस्य निरसनस्य अनन्तर जम्मू कश्मीर क्षेत्रे आतंकवादी घटनासु अपचिति दरीदृश्यते राज्यसभायाम् क्रिस्मिन् लिखित प्रत्युत्तरे तेन प्रतिपादितं यत् अस्मिन् वर्षे फरवरीमासपर्यन्तं पंचदश द्वृत्त आतंकवादि घटनास् अष्टातंकवादिन व्यापादिता ये हि पूर्ववर्षापेक्षया न्यूनतरा वर्तन्ते

अस्य मासस्य सप्तविंशतौ सप्तचत्वारिशदासनानां कृते मतदान भविष्यति मुख्यमन्त्री भाजपावरिष्ठनेता च सर्बानन्दसोनोवाल माज्लीत नामांकन प्रप्रितवान्

नागरिक उड्डयन निदेशालय नागरिक उड़डयन निदेशालयद्वारा कथितं यत् विमानचालका अन्ये च विमानकार्यकर्तार सुच्यौषधस्वीकरणात् अष्टचत्वारिशत् होरावधौ विमानं न चालयिष्यन्ति निदेशालयेन विमानकार्यकर्तुभ्य सुच्यौषधस्वीकृत्यनन्तरं विमानचालनाय विशेषदिशानिर्देशा प्रख्यापिता विमानकार्यकर्ता कार्यकर्त्री वा त्रिंशन्निमेषात्मककालाय दरीद्रक्ष्यते तदनन्तरं यदि अष्टचत्वारिशत् होरावधौ यदि तेन समस्या अनुभूयते तर्हि विशेषचिकित्सकै तदवधानं रक्षिष्यते संस्कृतवार्ताया संस्करणमिदं इदानीं आकाशवाणीत प्रसार्यते

तत्रैव समग्र देशे स्वस्थतामिति षण्णवति दशमलव नव क्रिमिता पंजीकृता अपि च चतुर्दशसहम्रं जना स्वस्थीभूय गृहं प्रत्यागता कोलकाताग्नि कोलकातायां ह्य द्रापन्नम् अभिकाण्डम् अभिलक्ष्य उच्चस्तरीय पर्यवेक्षण समिते संघटनं विहितम् अस्ति यस्यां हि रेलवेविभागस्य चत्वारो मुख्याधिकारिण वर्तन्ते रेलमन्त्री पीयूषगोयल ट्वीटलेखद्वारा समसूचयत् यत् रेलवेविभागाय यथोचितं साहाय्यं सम्पलब्यं कार्यते रेलवेसुरक्षामुख्यसचिव डॉ जॉयदीपगुप्ता अस्या समिते अध्यक्षतां विधास्यति दिल्ली बजट दिल्ली सर्वकारेण ऊनसप्तति सहस्रकोटि रूप्यकात्मक राशे वित्तीय संकल्पना प्रपत्रम् अद्य प्रस्तुतम्

सममेव यम्ना नद्या स्वच्छीकरणाय द्रिसहस्रकोटि रूप्यकात्मक राशि दिल्ली जल बोर्ड इत्यस्य नैकासां परियोजनानां च कृते चत्र्सप्तति अधिक द्विशतोत्तर त्रिसहस्र कोटि रूप्यकाणि प्रदत्तानि

तदर्थं सर्वकारेण नवत्यधिक त्रिसहस्रं कोटि रूप्यकाणि प्रस्तावितानि आवास योजना आवास नागर मन्त्रालयेन प्रतिपादितं यत् प्रधानमन्त्री नागर आवास योजनान्तर्गतं साम्प्रतं यावत् क्रिादश लक्षाधिक क्रिकोटि भवनानि स्वीकृतानि ष्ट्रि त्रयश्वत्वारिशत् लक्षभवनानि लाभार्थिभ्य प्रदत्तानि अपि च अवशिष्टानि निर्माणाधीनानि सन्ति

राष्ट्रपति तमिलनाडु राष्ट्रपति रामनाथकोविन्द त्रिदिवसीय यात्रार्थं अद्य तमिलनाडुनगरं प्रति प्रस्थास्यति तत्र स वेल्लूसनगरे श्व थिरूवल्लूवर विश्वविद्यालये षोडश दीक्षान्त समारोहे सहभागं विधास्यति धन्परीक्षा झारखंडस्य तिम्र धन्धरा दीपिका कुमारी अंकिता भकत कोमोलिकाबारी च पुणेमध्ये आयोजितेष् राष्ट्रिय ओलम्पिक धन्परीक्षणेष् उच्चतमं स्थानं प्राप्तवत्य